उच्चतमन्यायालयेनादय सप्तदश कर्णाटक विधायकानां सदन सदस्यताया अयोग्यता निर्णय यथावस्थ सुरक्षित

झारखण्डे भावि विधानसभा निर्वाचनस्य प्रथम चरणात्मक मतदानाय नामांकन पत्र प्रपूरणस्यादय अन्तिमो दिवसो विदयते प्रधानमंत्री प्रधानमन्त्री नरेन्द्रमोदी एकादशे ब्रिक्स शिखरोपवेशने भागं भजित् दवि दिवस व्यापिन्यै यात्रायै ब्राजीलदेशं सम्प्राप्त शिखरसम्मेलनं श्व समारभते किंच ब्रिक्स व्यापार परिषद मन्त्रणा अथ च ब्रिक्स व्यापार मंचायोजनं अदय विधास्यते अत्रान्तरे ब्रिक्स देशानाम् प्रमुखा उदयोगपतय वाणिज्यिक सहभागितां संवर्धनपरं संवाद समाचरिष्यन्ति सममेव न्यू डेवेलपमेंट बैंक इत्याख्येन न्तनारम्भितेन वित्तकोषेण सार्ध सम्बन्ध सुदृढीकरणप्रसंगे अपि चर्चा भविता सम्मेलनात् पृथक् प्रधानमन्त्री क्रमश रूस चीन ब्राजील राष्ट्रपतिभि सार्ध द्विपक्षीया वार्ता विधास्यति अनन्तरं स ब्रिक्स वाणिज्य मंचस्यावसान सत्रे सम्मिलितो अविष्यति तत प्रधानमन्त्री ब्राजील राष्ट्रपतिना समायोजयिष्यमाणे स्वागत समारोहे रात्रि भोजे च सहभागम आवक्ष्यति शीर्षन्यायालय उच्चतमन्यायालयेनाद्य सप्तदश कर्णाटक विधायकानां सदन सदस्यताया अयोग्यता निर्णय यथावस्थ स्रक्षित प्नरपि राज्ये दिसम्बर मासस्य पंचमे दिनांके आयोजयिष्यमाणे उपनिर्वाचने इमे विधायका स्पर्धितृम् अहन्ति इत्यपि सुनिश्चितम् शीर्षन्यायालयेन ध्येयमस्ति यत् ऐषमो जुलाईमासे विधानसभायं प्रवर्त्यमाने विश्वास मतकाले विधायका इमे सदने अन्पस्थिता आसन् अन्पस्थितिकारणात् विधायकान् विरूद्धय कांग्रेस जनतादलयो प्रतिदेवनान्गुणं तत्कालीनेन कर्णाटक विधानसभाध्यक्षेण रमेशक्मारेण सप्तदश विधायका इमे सदनायोग्यत्वेन समुदीरिता अनन्तरं अयोग्य विधायकानाम् एतेषां त्यागपत्र प्रदानवशात् कर्णाटकस्य म्ख्यमन्त्रिण क्मारस्वामीवर्यस्य नेतृत्वय्तं तत्कालीनं सत्तारूढ प्रशासनं पद त्यागाय विवशीभूतमासीत् जम्मुमकश्मीरम् जम्मूकश्मीरे जम्मू सम्भागस्य राजौरी जनपदस्थे नियन्त्रण सीम्नि त्र्यधिक पंचदश शतं बंकर इति सीम्नि स्थात्राणां निर्माणकार्य सम्पन्नतामगात तत्र हि सप्ताधिक दवि चत्वारिंशत्शतं सीम्नि स्थात्राणां निर्माणकार्य साम्प्रतं सजवं विधीयते जनपद विकासायुक्तेन मोहम्मद ऐजाज़ असद इत्यमूना सूचनेयं अद्य प्रख्यापिता असौ सीमक्षेत्रेष् प्रचल्यमानानां सीम स्थात्राणां निर्माण कार्यस्य समीक्षणानन्तरं मन्त्रणाम् समाचरति स्म

मेघालयस्य राज्यपालेन तथागत रॉय वर्येण शिलौंगस्थे राजभवने असौ प्रतिज्ञापितः मोहम्मद रफिक मेघालयोच्चन्यायालयस्य अष्टादश न्यायाधीश प्रमुख अवर्तत महाराष्ट्रम् महाराष्ट्रे गतदिने राष्ट्रपति शासन प्रवर्तनात् परं संय्ति दलै प्रशासन विरचनाय राजनैतिक गतिविधय तीव्रीभूता कांग्रेस शिवसेनादलाभ्यां सार्ध एन्सीपी इति तृतीय बृहत्तम जनादेश आक् राष्ट्रवादि कांग्रेस्दलं राज्ये नूतन प्रशासन विरचनाय यथासम्भव प्रयासान् समाचरति मुम्बय्यां अद्य प्रात सम्पन्ने उपवेशने एन्सीपी दलेन पंचसदस्यात्मिका एका समिति संघटिता